झारखण्ड निर्वाचनम् झारखण्ड विधानसभा निर्वाचनस्य दवितीय चरणार्थं सर्वा सज्जता विहिता सन्ति झारखण्ड विधानसभा निर्वाचनस्य द्वितीय चरणस्य नैर्वाचनिक प्रचाराभियानं गतसायम् अवसितम्

मतगणना अस्य मासस्य नवमे दिनांके भविष्यति

असौ अद्य मध्याहने सिरोही जनपदस्य आबू रोड स्थलं सम्प्राप्स्यति तत्र च सामाजिक परिवर्तनार्थं महिला सबलीकरणम् इत्याख्यं सम्मेलनं सम्बोधयिष्यति

दिल्ली प्रद्षणम् केन्द्रीय प्रदूषण नियन्त्रण मण्डल सन्नीतेन कार्यबलेन दिल्ल्यां राष्ट्रिय राजधानी क्षेत्रे प्रद्षण नियन्त्रणार्थं सावधानतया स्थात् सर्वाण्यपि अभिकरणानि प्रोक्तानि

गतदिने उत्तरप्रदेशे उन्नावजनपदे पीडिता पंचभि जनै प्रज्वालिता सर्वे अभियुक्ता आरक्षिभि निगडिता सन्ति अस्या घटनाया विस्तृतविवरणं प्रदातुं मुख्यमन्त्रिणा योगि आदित्यनाथेन आरक्षिमहानिरीक्षक निर्दिष्ट

ग़्हमन्त्री अमितशाह अस्य सम्मेलनस्य औद्घाटनिक सत्रं सम्बोधयिष्यति प्रधानमन्त्री नरेन्द्रमोदी सम्मेलनस्य समापनसत्रं सम्बोधयिष्यति

राज्यसभायां लिखितोत्तर माध्यमेन विदेशराज्यमन्त्रिणा वी मरलीधरेण एतत् विज्ञापितम्